श्रीमोदिना अप्रे निगदितं यत्कृषकाणां हिताय तेषां च बृहत्स् आपणिस् स्वोदपादन प्रापणाय सर्वकारेण किसानउड़ान रेल किसान नाम्ना च योजने समारव्ये स्त

समाप्ति उत्तराखण्ड त्रासदी उत्तराखण्डस्य जलप्लावन क्षेत्रेष् रक्षादलै रक्षणकार्यं प्रवाहिगत्या विधीयते तत्र अध्नावधि अष्टादशशवा सम्प्राता

मुख्यमन्त्रिणा त्रिवेन्द्र सिंह रावतेन प्रोक्तं यत् अप्राप्ता जना अन्विष्यमाणा सन्ति असौ प्रोक्तवान् यत् राज्यस्य आरक्षक महानिदेशकेन क्षेत्रेऽस्मिन् ह्यस्तनमेव निरीक्षणकार्यं चालितम् गढ़वाल विभागांशस्य आयुक्त उप महानिरीक्षकौ च अद्य घटनास्थले भविष्यतः इति तेनोक्तं एतदतिरिच्य चमोली जनपद प्रशासनस्य सर्वे अधिकारिण घटनास्थले संरक्षणकार्ये च संलग्ना सन्ति जनपद प्रशासनं राष्ट्रिय राज्य आपदा प्रबंधनं सशस्त्र सीमाबलं भारततिब्बतसीमारक्षीणां रक्षा दलै च रक्षणकार्यं द्रतगत्या सम्पाद्यते प्रभावित क्षेत्रेष् उदग्रयानेन अन्नापूर्ति क्रियते अद्यावधि पञ्चत्रिंशत् जना कृत्रिम गुहायामवरूद्वा सन्ति तेषां च सकुशलनिष्काषनाय सम्बन्धितविभागिन संघर्षरता सन्ति मुख्यमन्त्रिणा इदमपि प्रतिपादितं यत् वैज्ञानिकै विशेषज्ञेश्च साकं मिलित्वा दर्घटनाया कारणं किमस्ति इति सर्वकार अनुसन्धास्यति येन भविष्ये सम्भाव्यमानाया दुर्घटनाया निरशनं स्यात्

स्वास्थ्य परिवार कल्याण मन्त्रालयेन सूचितं यत् विगतास् चतुर्विंशतिहोरास् भूयोऽपि षड्रिंशत् सहस्रं जनैः सूच्यौषधः संप्राप्त श्व द्वादशराज्येष् अपि सुच्यौषधवितरणप्रक्रिया भविष्यति येष् असम बिहार गुजरात हरियाणा झारखण्ड कर्नाटक केरल मणिप्र ओडिशा राजस्थान त्रिप्रा उत्तराखण्ड प्रदेशाः सम्मिलिताः भविष्यंति तत्रैव देशे कोविड एकोनविंशत्याः महामार्या स्वस्थताप्रतिशतता अध्यना सप्तनवति दशमलव द्वि शुन्य मिता पंजीकृता विगते अहोरात्रे प्रायश द्वादशसहस्राधिका रोगिण अनेन संक्रमणेन स्वस्थीभूता देशे संक्रमितानां प्रतिशतता द्वि दशमलव त्रि सप्तमिता संवृत्ता अपि च ह्य चत्रशीति संक्रमिता दिवंगता सहैव मृतकानां संख्या प्रवर्ध्य पञ्चपञ्चाशत्सहम्राधिकैकलक्षा जाता भारतीय चिकित्सा अनुसन्धान परिषदा प्रतिपादितं यत् देशस्य विभिन्नास् प्रयोगशालास् द्वात्रिंशत्सहम्राधिकपञ्चलक्षजनानां परीक्षणानि भूतानि राज्यसभा जक अद्य राज्यसभायां जम्मू कश्मीर पुनर्गठन संशोधन विधेयकम् एकविंशत्यधिक द्विसहस्राब्दम् स्वीकृतम् विधेयकोऽयं जम्मू कश्मीर प्नर्गठन संशोधन अध्यादेश एकविंशत्यधिक द्विसहस्राब्दस्य स्थानं प्रहीष्यति एतद्वारा भारतीय प्रशासनिकसेवाया भारतीय प्लिस सेवाया भारतीय वनसेवायाश्च जम्मू काश्मीर स्कन्धस्य अरूणाचल प्रदेश गोआ मिजोरम आदिष् केन्द्रशासित प्रदेशेष् च समावेशनं कृतम् अद्य सदने गृहराज्यमन्त्री किशन रेड्डी न्यगादीत् यत् गत द्विवर्षयो जम्मू काश्मीरे विकासकार्याणि अवर्धन्त एवा स्वातन्त्योत्तरकाल अयं प्रथमोऽवसर आसीत् यदा खण्ड विकास परिषदीय निर्वाचने अष्टनवति प्रतिशता मतदातार मतदानं कृतवन्त तेनोक्तं यत् ग्रामीण विकासार्थं मनरेगाकार्यक्रमान्तर्गते एक सहस्रकोटिरुप्यकाणि अपि प्रदत्तानि स अवदत् यत् द्वाविंशत्यधिक द्विसहस्राब्दस्य दिसम्बरमास पर्यन्तं काश्मीर रेलसेवाया अंगं भविष्यति

राज्यसभा ज क भारतीयजनतादलस्य दृष्यन्त गौतमेन सप्तत्युत्तरत्रिशतानुच्छेदस्य अवसानेन जम्मू काश्मीरीयाना जनाना कृते ग्राम्यस्तरेष् प्रतिनिधि चयनस्य स्वतन्त्रता जाता सम्प्रति तत्र सगौरवं त्रिवर्णध्वज उत्तोलीयते तत्रत्याश्च जनजातय आरक्षणादि लाभेभ्य अस्पृष्टा आसन् सम्प्रति ते लाभं प्राप्तवन्ति अखिलभारतीय अन्नाद्रमुक मुनेत्र कडगम दलनेत्रा अनवनीतकृष्णन वर्येण पाकिस्तानचीन देशस्यो क्ष्द्रतामभिलक्ष्य लद्दाखक्षेत्रस्य केन्द्रशासितप्रदेशत्वेन परिगठनस्य स्वागतं कृतम्

इतपूर्वं भारतदेशेन स्वीयां प्रथम पार्यां सप्तत्रिंशदधिकत्रिशतं धवनांका समर्जिता तत्र इंग्लैण्डदलेन अद्य द्विचत्वारिंशदधिक द्विशंत धावनांका अर्जिता इंग्लैण्डदेशेन जेम्स एण्डरसन जोफा आर्चरौ द्वि द्वि धावकौ गृहीतौ